प्रधानमन्त्रिणा श्री नरेन्द्रमोपिना ट्वीट् माध्यमेन वक्रानिका प्रशंसिता अपि च कोविड् नव श इति वश्विक सङ्कमणं पराङ्मुखीकर्त्य महत्वपूर्ण प क्षेपपर एतन्निर्णय प्रतिपापितः प्रशासनं कृषकसङ्घटनानि च अन्तरा श्व नवपिल्ल्यां अग्रिमस्तरीया वार्ता सम्पत्स्यन्ते

कश्मीरोपत्यकायां लद ाखक्षेत्रे च अल्पामात्रायां हिमपात समजायत

औषधमहानियन्त्रक सूच्यौषधम् भारतस्य औषध महानियन्त्रकेण वीजी सोमानिना अद्य पित्स्थतौ सीरम इंस्टीट्यूट ऑव् इंडिया इति भारतीय रक्तो संस्थानेन निर्मितस्य कोविशील्ड इति सुच्यौषधस्य भारत बायोटेक् समवाय विनिर्मितस्य कोवक्ष्सीन् इति कोविड् प्रतिरोधि सूच्यौषधस्य च सीमित प्रयोगाय अन्मति प्र त्ता श्रीमता सोमानिना प्रोक्तं यत् उभ्यो सूच्यौषधयो पत्कालिकोपयोगार्थ विशेषज्ञ समिते अन्मो नानन्तरं केन्द्रीयोषध मानक नियन्त्रण संघटनेन स्वीकृति प्र त्ता तेन सबलं व्याहृतं यत् सूच्यौषधद्वयमपि पूर्णत स्रक्षितं वर्तते

अमुना प्रत्यपाणि यत् भारतीय रक्तो संस्थान भारत बॉयोटेक इत्येतयोः समवाययोः संङ्कमण प्रतिरोधी सुच्यौवधिभ्यां प्रयोगानुमति प्राप्तेसति राष्ट्रं जवीयस्यागत्या कोरोणा संङ्क्रमणात् मुक्तं भविष्यति श्रीमोपिना ट्वीट्माध्येन ऐशवासिन वज्ञानिकाश्च वर्धापिता कोरोणा संक्रमणं विरूध्य संघर्षे अयं निर्णायक कालः प्रतिपापित

विगते अहोरात्रावधौ त्रि षष्ट्यधिक नवशतोत्तर विंशति सहस्रं जना अस्माद् रोगाद् विम्क्ता

साम्प्रतं विंशत्यधिक द्विशतोत्तर सप्रचत्वारिंशत् सहस्राधिक द्वि लक्षमिता कोविड् रोगिण विभिन्नस्थलेष् उपचर्यन्ते

अध्नावधि ोशे कोरोणा कारणात् पञ्चत्रिंश धिक चत्शतोत्तरोन पञ्चाशत् सहस्राधिक्क लक्षं जना मृत्युम् उपगता भारतीयायूर्विज्ञानान् सन्धान परिष अन्सारि इथानीं यावत् प्रेशे अष् चत्वारिंश ल्लक्षाधिक सप्र श कोटि मितानि कोरोणा परीक्षणानि जातानि

इति वार्ता